उत्तर प्रदेशे आरक्षि महानिदेशकेनोक्तं यत् राज्ये स्थिति शान्तिपूर्णा सुरक्षाप्रबन्धाश्च सुव्यवस्थिता उत्तर भारते बहुषु स्थलेषु शैत्य प्रकोप प्रवर्तते आधार देशे आधार इति विशिष्टाभिज्ञान संख्यान्तर्गतं पञ्जीकरणाय जनानां संख्या पादोनार्ब्यिताधिका सञ्जातास्ति देशस्य पञ्चविंशत्युत्तर शत कोटि नागरिका आधार इति विशिष्टाभिज्ञान प्रमाणयुता वर्तन्ते साम्प्रतिके समये प्रतिदिनं त्रि कोटिमिता अनुरोधा प्राप्यन्ते आधार विवरणम् अद्यतनं विधातुं जना सज्जीभूता वर्तन्ते हरदीप पुरी केन्द्रीयमन्त्रिणा हरदीप प्रिणोक्तं यत् संशोधित नागरिकताधिनियमात् भारतस्य धर्मनिरपेक्ष स्वरूपे किमपि परिवर्तनं न भविष्यति तेनाक्षिप्तं यत् विधिमेनमालक्ष्य विपक्षि दलानि भ्रमोत्पादनस्य कार्यमाचरन्ति तेन ट्वीट् सन्देश माध्यमेन श्रीमता पुरिणा उक्तं यत् संशोधित नागरिकताधिनियमात् कस्यचिदपि भारतीय नागरिकस्य अधिकाराणां हननं न भविष्यति मनाक् स कस्यचिदपि धर्मस्य जाते वंशस्य सम्प्रदायस्य कुलस्य वा भवेत् उत्तरप्रदेशसरक्षाप्रबन्धा उत्तरप्रदेशेऽद्य विशिष्ट प्रार्थना सभामालक्ष्य विशेष स्रक्षा प्रबन्धेष् शान्तिपूर्णा स्थिति वर्तते साम्प्रतं कस्मापि अप्रियघटनाया सूचना नाधिगतास्ति राज्यस्य रक्षि महानिदेशकेन ओपीसिंहेन सूचितं यत् आरक्षिदलेन एतदर्थं बहव प्रयासा विहिता नागरिकता संशोधनाधिनियम विषये जागरूकतोत्पादनाय शान्ति समितीनाम् उपवेशनानि आयोजितानि सुरक्षा स्थितिमालक्ष्य लखनऊ अलीगढ़ आगरा मथुरा बुलंदशहरेष अपि च अपेष् एकविंशति जनपदेष्वपि आन्तर्जालिकसेवा पिहिता सन्ति मिग् विमानम् कारगिल युद्धे नवनवत्युत्तर नवदशत शतमे वर्षे मुख्य भूमिकायां मिग् सप्तविंशति विमानानि अद्य स्वीयान्तिमम् उड्डयनं विधास्यन्ति एतानि यौद्ध विमानानि त्रि दशकादधिक समयं यावत् भारतीयवायुसेनायां सेवारतानि आसन् अवसरेऽस्मिन् जोधपुरे समायोजिते एकस्मिन् समारोहे वायुसेनाया पूर्वाधिकारिण समेत्य सेवारता अधिकारिणश्चापि उपस्थिता भविष्यन्ति दक्षिण पश्चिमीय वायुसैन्य प्रमुख एयर मार्शल् एस्केघोटिया समारोहस्य अध्यक्षतां विधास्यति उपराष्ट्रपति उपराष्ट्रपतिना एम् वैंकैया नायड्नाद्य दृश्य श्रव्य सम्वाद माध्यमेन ओडिशाया बलांगीर एल् पीजीबॉटलिंग् प्लांट् इति कार्यशाला राष्ट्राय समर्पिता शैत्य प्रकोपात उपराष्ट्रपते ओडिशा यात्रा निरस्ता जाता तेन दृश्य श्रव्यमाध्यमेन एव जनसमृह सम्बोधित उपराष्ट्रपते अन्पस्थितौ ओडिशाया राज्यपालेन प्रोगणेशीलाल वर्येण अस्या कार्यशालाया श्भारम्भ विहित अस्या निर्माणे त्र्यधिक शत कोटि रूप्यकाणि व्ययीभूतानि अवसरेऽस्मिन् केन्द्रीयशिला तैल मन्त्री धर्मेन्द्र प्रधान बलांगीरस्य अनेके गणमान्यजना च समुपस्थिता आसन् अमित शाह केन्द्रीयगृहमन्त्रिणा अमितशाहेनोक्तं यत् देशस्य कृते सर्वोच्चबलिदानाय हिमाचल प्रदेशस्य वीरा एव अग्रगण्या वर्तन्ते